गृहमन्त्रिणा अमितशाहेन गुजरातराज्यस्य गांधीनगरस्थस्य कोलावाडाग्रामे ऑक्सीजन निर्माण संयंत्रस्य श्भारम्भो विहित प्रशासनेन राज्यानि केन्द्रशासित प्रदेशान् च प्राणवायो गमनाय विशेष हरित वीथ्या विनिर्माणाय पत्रमेकं विलिखितम् देशे अद्यावधौ प्रायश सार्धत्रयोदश कोटितोप्यधिकै जनै कोरोना प्रतिरोधि सूच्यौषधं सम्प्राप्तम् चत्र्विशति होरास् षड्चत्वारिंशत्सहस्राधिक त्रिलक्षजना संक्रमिता अभ्वन् न्यायमूर्ति नूतलपतिवेंकटरमणावर्य अष्टचत्वारिंशत्तमस्य प्रधानन्यायधीशस्य रूपे शपथं ग़हीतवान् आईपीएल् क्रिकेटप्रतिस्पर्धायां अद्य राजस्थानरॉयल्सदलस्य प्रतिस्पर्धा कोलकाता नाइट राइडर्सदलेन साकं मुम्बईमहानगरस्य वानखेड़े क्रीकेट क्रीडाइगणे सायंकाले सार्धसप्तवादने भविष्यति

एतदर्थ निवेद्यते यत् असावधानताया आचरणं मा व्यवहरन्त् सममेव पञ्चचत्वारिंशत् वर्षात् अधिकै सर्वै जनै सूच्यौषधं स्वीकरणीयम् भवन्त भवत्य च सुरक्षाया उपायत्रयस्य संकल्पं स्वीकृत्य सुरक्षिता भवन्तु म्खावरकं सन्धारयन्तु सामाजिकदौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्त्

एकस्मिन् आयोजिते समारोहे तेन ग्रामीण जनानां प्रशंसापि विहिता तेन भणितं यत् विगते वर्षे जना महामारीं विरुध्य एकता भावनया परस्पर सहयोगेन च य्दधं कृतवन्त आसन्

श्रीमता मोदिना निष्पादितम् यत् प्रशासनेन प्रधानमन्त्री गरीब कल्याणअन्न योजनान्तर्गतं आगामिदविमास पर्यन्तम् निर्धन जनेभ्य निशुल्केन खाद्यान्नमपि प्रदास्यते अनया योजनया प्रायश अशीतिकोटि जना लाभान्विता भविष्यन्ति प्रधानमन्त्री कोविड नवदश इत्यनया महामार्यया म्क्ति प्राप्त् सर्वे पञ्चायत प्रम्खै आग्रह अपि कृतवान् तेन सबलं प्रतिपादितं यत् केन्द्रं ग्रामीण क्षेत्राणि आत्मनिर्भर भारत अन्तर्गतं समाविष्ट्ं तत्परं अस्ति

प्रधानमन्त्रिणा विश्वास प्रकटित यत ई स्वामित्व योजना अन्तर्गतं लाभार्थिन बैंकेन वित्तीयसंस्थाभि च ऋण सौविध्यं प्राप्तूं शक्नूवन्ति

कोविड अद्यतनम् प्रशासनेन अदय प्रतिपादितं यत् देशे अदयावधौ प्रायश त्रयोदश कोटितोप्यधिकै जनै कोरोना प्रतिरोधि सूच्यौषधम् अधिगतम् स्वास्थ्य मन्त्रालयेन प्रोक्तं यत् विगतास् चत्र्विशतिहोरास् षड्चत्वारिंशत्सहस्राधिक त्रिलक्षमितेभ्यः जनेभ्यः सूच्यौषधं वितरितम् सहैव नवदशसहस्राधिक दवि लक्ष जना कोरोणा संक्रमणेन स्वस्थीभूय गृहं प्रत्यागता तट्रैव कोराणा महामार्या स्वस्थतामिति साम्प्रतं त्र्यशीति दशमलव चत्वारि नवमिता अंकिता मन्त्रालयेन कथितं यत् विगते अहोरात्रे षड् शताधिक द्वि सहस्रं जना मृत्युम् उपगता केन्द्र प्राणवाय् प्रशासनेन सर्वाणि राज्यानि केन्द्र शासित प्रदेशान् च प्राणवाय् यानानां कृते स्रक्षां सुनिश्चित्ं हरित वीथ्या विनिर्माणाय च पत्रमेकम् विलिखितम् अवधेयास्पदं वर्तते यत् गृहमन्त्रिणा हय कोविड स्थिते समीक्षा कृतासीत् अपि च प्राणवायो आपूर्ति वर्धयित् दिङ्निर्देशा अपि प्रदत्ता आसीत्

ग़हमन्त्रालय स्वीकृत वितरण योजना अधीनं सम्पूर्ण देशे चिकित्सा वायो व्यवस्थां करोति इति

योजनान्तर्गतं प्रतिमासं प्रतिजन पञ्चकिलोग्राम परिमितं खाद्यान्नं प्रदास्यते इयं योजना मई जुन मास पर्यन्तं प्रचलिष्यति अनया प्रायशः अशीतिकोटि जनाः लाभान्विताः भविष्यन्ति

यतोहि राज्यमिदं औद्योगिक राज्यमस्ति अपि च गुजतराज्येन अन्येष् राज्येष् प्राणवायो आपूर्ति अपि कृता

गृहमन्त्रिणा कथितं यत् पीएम् केयर्स फण्डइत्यनेन कोषेन सम्पूर्ण देशे प्राण वायो विनिर्माणाय शतानि संयन्त्राणि अनुमति प्रदत्ता आसीत् येष् एकादश संयंत्राणि गुजराते एव भविष्यन्ति

म्ख्य निर्वाचन आय्क्त स्शील चन्द्रावर्य निर्वाचन आय्क्त राजीव क्मारवर्येण राज्यस्य म्ख्यसचिवेन आरक्षक महानिदेशकेन च सार्ध उपवेशनमेकं विहितम्

राष्ट्रपतिना श्रीरामनाथकोविन्देन नवदेहल्यां राष्ट्रपति भवने समायोजिते साधारण समारोहे रमणावर्य शपथग्रहणं प्रदत्तम् वेंकटवर्येण न्यायमूर्ति शरद अरविन्द बोबडे वर्यस्य स्थाने आगत अस्ति

इयं कार्यक्रमस्य षड्सप्ततितमी श्रृंखला भविष्यति

क्रीडावार्ता आईपीएल् क्रिकेटप्रतिस्पर्धायां अद्य राजस्थानरॉयल्सदलस्य प्रतिस्पर्धा कोलकाता नाइट राइडर्सदलेन साकं मुम्बईमहानगरस्य वानखेडे क्रीकेट क्रीडाङ्गणे सायंकाले सार्धसप्तवादने भविष्यति हय प्रतिस्पर्धायां पञ्जाब किंग्सदलेन मुम्बई इण्डियन्सदलं नवधावनांकै पराजितं कृतम् इति वार्ता